अष्टाशीत्यधिक दवि शतमासनानाञ्कृते महाराष्ट्रे अथ च नवत्यासनेष् हरियाणा विधानासभानिर्वाचनेभ्यो सोमवासरे मतदानं अनृष्ठितमासीत्

हरियाणायां चा अप्रेक्षया भाज ादलेन प्रबल जनादेश प्राप्त

आकाशवाण्या समं वार्ताप्रसंगे दलप्रवक्ता जी वी एल नरसिम्हा राव न्यगादीत यत् भाज ादलेन महाराष्ट्रे अभूतप्र्वे विजय प्राप्त एतदन् भाज ादलमेव प्रशासन दे विराजयिष्यते

जुम्मू जम्मूकश्मीरे लददाखे च प्रखण्ड विकास रिषद निर्वाचनेष् प्रतिशतं अष्टनवतिमितं मतदानं उट्टंकितम् मतगणना प्रवर्तमाना अस्ति दवाविंशति जन दानां ञ्चषष्टि अधिकैकसहस्र प्रत्याशिनां भाग्यस्य निर्णय अदय भविष्यति प्रसार भारती प्रसारभारत्या अध्यक्ष ए स्र्यप्रकाश अद्य नवदिल्ल्यां प्रसार भारती समाचार सेवाया उद्घाटनम् अकरोत् अस्मिन् अवसरे तेन प्रोक्तम् यत् अयम् महत्व ूर्ण दक्षे वर्तते यद्धि आकाशवाणी द्रदर्शनाभ्यां साहाय्यं करिष्यति तेन प्रोक्तम् यत् अयम् सजीव प्रसारणाय महत्व ूर्णो भविष्यति

डेरा बाबा नानक ग्रूदवारे अन्ताराष्ट्रिय सीम्नि केन्द्रे हस्ताक्षर समारोहे विदेश मंत्रालय रक्षा मंत्रालय गृहमंत्रालयानाम् अधिकारिण अथ च जाब प्रशासनस्य प्रतिनिधय उ स्थिताः आसन् प्रतिनिधिनाम् उ स्थितौ सन्धि त्रे हस्ताक्षरै सह करतार रवीथे औ चारिक शुभारंभ संजात उच्चतमन्यायालय कश्मीरम् उच्चतमन्यायालयेन जम्मूकश्मीर प्रशासनाय प्रोक्तं यत् तत् राष्ट्रहितं निध्याय राज्ये प्रवर्तित प्रतिबन्धेष् यथासमयं रिष्कारं कुर्यात् न्यायाधीश त्रयस्य खण्डाीठस्य समक्षं राज्ये प्रतिबन्ध विषयके प्रकरणे वादश्रवणं प्रचलति स्म